प्रधानमन्त्रीजनसेवा प्रधानमन्त्रिणा नरेन्द्र मोदिना स्वदलीय सांसदा तत्तन्निर्वाचन क्षेत्रेष् सम्प्रति राजनीति विहाय जनसेवा विधातु विनिर्दिष्टा श्रीमोदिना स्वदलीय सांसदा निर्दिष्टा यत् ते तत्तत्क्षेत्रेष् जनहिताय वर्तमाना नव शासन योजना प्रति जनान् जागरूकान् कुर्यु प्रधानमन्त्री अद्य संसत्प्स्तकालय भवने स्वदलीय सांसदान् संबोधयति स्मा मम्बईभवनपात मुम्बय्या डोंगरी क्षेत्रे अद्य भवनध्वंसात् न्यूनातिन्न्यूना द्वादश जना मृत्युमुपगता अन्ये पञ्चाशत् ध्वंसावशेषेषु वर्तन्ते इत्याशङ्क्यते घटनास्थलस्य निरीक्षणानन्तरं महाराष्ट्र पौर विकास मन्त्रिणा राधाकृष्ण विखे पाटिलेन वार्ताहरा संसूचिता यत् सुरक्षादृशा ध्वस्त भवनस्य समीपवर्ति भवनेभ्योऽपि जना बहिरानीता महाराष्ट्र मुख्यमन्त्रिणा देवेन्द्र फडणवीसेन निगदितं यद् ध्वस्त भवनं शतवर्ष प्रातनमासीत् प्रधानमन्त्रिणा नरेन्द्र मोदिना घटनामेनाम् आलक्ष्य गभीर शोक प्रकाशितोऽस्ति सर्वोच्चन्यायालयकर्नाटकम् सर्वोच्च न्यायालयेन कर्णाटकस्य कांप्रेस् जनतादल सेक्यूलर् संयुते पञ्चदश विद्रोहि विधायकानां त्यागपत्र स्वीकृति विषयको निर्णय श्व प्रभाते श्रावयिष्यते वाद श्रवणावसरे कर्णाटक विधानसभाध्यक्षेण के आर् रमेश कुमारेण न्यायालय अन्रुद्ध यदनेन प्रकरणस्यास्य यथास्थिति संधारण विषयक प्राक्तन निर्णय संशोधनीय

अस्य निप्रहणाय द्विलक्ष रूप्यकात्मक पुरस्कार घोषितोऽवर्तत अस्मदीयो वार्ताहरो विज्ञापयति यत् सोपोर वासी बशीर अहमद पोन्नु नामधेय एष आतङ्कवादी श्रीनगरे धृत

असमे त्रिंशज्जनपदा जलमग्ना सूच्यते जलाप्लाव कारणात् तत्र इदानी यावत् पञ्चदश जना मृत्युमुखं प्रविष्टा अन्ये त्रिचत्वारिशल्लक्ष संख्याका जना द्ष्प्रभाविता वर्तन्ते काजीरंगा राष्ट्रियोद्यानस्य प्रतिशतं नवति मितो भाग जलेनाप्लावित सूच्यते साहाय्योद्वार कार्याणि सजवं प्रवर्तन्ते अत्रान्तरे बिहारे मुख्यमन्त्रिणा नीतीश कुमारेण राज्य विधानसभायां संसूचितं यत् जलाप्लावात् द्वादशस् जनपदेश् विद्यमाना पञ्चविंशति लक्ष संख्याका जना दुष्प्रभाविता विद्यन्ते प्रधानमन्त्री गुरुपूर्णिमा गुरुपूर्णिमावसरे प्रधानमन्त्रिणा नरेन्द्र मोदिना शिक्षका गुरव मार्गनिर्देशकाश्च समभिनिन्दता तेनोक्तं यत् गुरुपूर्णिमाया शुभावसरे तेषां समेषां गुरूणाम् अभिनन्दनानि येषां समाजोन्नयने प्रमुखा भूमिकाविद्यत